ह्य श्रीमोदी दृश्यश्रव्यप्रणात्या अन्ताराष्ट्रियं भारतीमहोत्सवं समबोधयत् श्रीमोदिना प्रोक्तं यत् पञ्चदश कोटिभि महिलाभि मुद्राऋणस्य लाभ सम्प्राप्तोऽस्ति पेरिस जलवाय् सन्धे पञ्चमवार्षिक्या अवसरे अद्य प्रधानमन्त्री श्रीनरेन्द्रमोदी वैश्विक जलवाय् शिखर सम्मेलनं सम्बोधयिष्यति अपिच कोरोनामहामार्याः विरुध्ये युद्धे भारतेन प्रशंसार्हाः सफलता अधिगता स्वस्थताप्रतिशतता संवर्ध्य पंचनवति दशमलव द्वि त्रिपरिमिता जाता

भवन्तोऽपि अस्माभि सह स्रक्षाया उपायत्रयस्य संकल्पं स्वीक्वन्त् मुखावरंक सन्धारयन्त् सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु पीएम फिक्की प्रधानमन्त्री नोन्द्रमोदी अद्य एकादशवादने फिक्कीसमूहस्य त्रिनवतितमे वार्षिक सम्मेलने उद्घाटनसत्र सम्बोधयिष्यति प्रधानमन्त्रिणा प्रोक्तमस्ति यत् स भारतीय अर्थव्यवस्थाया प्रसुतक्षेत्राणां विषये चर्चां विधास्यति विदिवसात्मकस्य दृश्यश्रव्यप्रणाल्यात्मकस्य सम्मेलनस्य अस्मिन वर्षे ध्येयवाक्यं वर्तते प्रेरितं भारतम् इति मोदी उज़्ब्रिस्तान भारत प्रधानमंत्री श्री नरेन्द्रमोदी उज़्बेकिस्तानदेशस्य राष्ट्राध्यक्षेण शौकत मिर्जियोयेव वर्येण सह प्रथमे उच्चस्तरीय आभासी उपवेशने ह्य कोरोणामहामारी सन्दर्भे उभयोः देशयोः द्विपक्षीय पारस्परिक पक्षाणां वर्धने बलं दत्तवान्

अत्रावसरे असौ न्यगादीत् यत् उभौ देशौ अफगानिस्तान देशेऽपि शान्तिप्रक्रियाया समर्थकौ स्तः

श्रीमोदिना प्रोक्तं यत पञ्चदश कोटिभि महिलाभि मुद्राऋणस्य लाभ सम्प्राप्तोऽस्ति

पेरिससन्धि जलवाय परिवर्तन नियंत्रण प्रक्रियायां मुख्यं स्थानं भजते पर्यावरणमन्त्रिणा प्रकाश जावडेकर महोदयेन प्रोक्तं यत् जलवाय् परिवर्तनं अकस्मात् जायमानं परिवर्तनं नास्ति एतत् विगतशताब्द्यारभ्य पर्यावरणस्योपरि पतितानां दृष्प्रभावानां परिणामो विद्यते

नवदिल्याम ह्य वार्ताहरान समबोधयत् कृषिमन्त्री नरेन्द्रसिंह तोमरः न्यगादीत् यत् कृषकाः न हि केवलं खाद्यान्न आपणे एव प्रत्युत क्त्रचिदपि नैजम् उत्पादं निजनिर्धारितमृत्ये विक्रेत् समर्थाः सन्त्